प्रोक्तं च यद भारतीयेभ्य स्व पक्षमपस्थापयित् कस्यचिदन्यस्य नास्ति आवश्यकता जम्मूकश्मीरे पृथक् पृथक् संजाते प्रतिसंघर्षद्वये आतंकि चतुष्कं व्यापादितं एको भा इच वीरतां गत रक्षामन्त्री राजनाथसिंह अद्य मुम्बय्यां स्वदेशे निर्मितं आईएनएस खण्डेरीत्याख्यं योधृ जलपोतं जलावतरणम् अकारयत् प्रधानमन्त्री श्रीनरेन्द्रमोदी श्व आवाशवाण्या मन की बात कार्यक्रमे स्वविचारान् राष्ट्रं प्रत प्रस्तोष्यति अफगानिस्ताने राष्ट्रपति निर्वाचनं सुदृढ सुरक्षा प्रबन्धेष् सुतरामायोज्यते भारतस्य प्रत्युत्तरम् भारतेनोक्तं यद् अस्मद्देशीयभ्यो नागरिकेभ्य स्वकीय पक्षोपस्थापनाय न कस्यचिदपि अपरस्यावश्यकता वर्तते ईदूशानां जनानां तु कदापि नास्ति आवश्यकता यै घृणासिक्त विचारधाराभि आतंकवाद प्रसार्यते प्रत्युत्तर प्रदानाधिकारं स्वीकृत्य संयुक्तराष्ट्रे भारतस्य स्थायिप्रतिनिधीनां प्राथमा सचिवा विदिशा मैत्री प्रोदीरितवती यत् पाकिस्तानीय प्रधानमन्त्रिणा इमरान खानेन यत् प्रोक्तं तत् द्भाग्यवशात् विश्वस्मिन् अपि विश्वे निर्ममं चित्रणं प्रस्तौति संयुक्तराष्ट्र महासभाया चतुस्सप्तति तमे सत्रे पाकिस्तानस्य प्रधानमन्त्रिण इमरान खानस्य वक्तव्यानि क ्मि् आलोचयन्ती विदिशा मैत्री उक्तवती यत् इमरानखानस्य भाषण विभाजनकरम् आसीत् विदिशा मैत्री ईरितवती यत् महासभाया अस्य मंचस्य ईदृश दुरुपयोग स्यात् इति न कदाचिदपि श्रुतं दृष्म् च साक्षात्सामान्य रूपेण वदामश्चेत् इमरानस्येद भाषणं घूणास्पदम् अवर्तत

असौ अमेरिकाया सप्त दिवस व्यापि यात्रानन्तरं ह्य निशीथे न्यूयॉर्कत प्रस्थितवान्

समवन जनपदे आतंकित्रयम् व्यापादितमिति ब्रते जम्मृक्षेत्रीय आरक्षि महानिरीक्षक म्केश सिह अथ चैक सन्यभ ज्ञि चापि हतिंगत द्वौ आरक्षिणौ च व्रणितौ

राजनाथ खण्डेरीयोधपोत रक्षामन्त्री राजनाथसिंहो न्यगादीत् यत् पाकिस्तानेन सुतरां संज्ञेयं यत् अस्माकं प्रशासनं दृढसंकल्पपूर्णमस्ति

स्वदेशे एव निर्मितस्य कालवेरीति द्वितीय श्रेण्या डीजल विद्यत् योधृ जलपोतस्य आईएनएस खण्डेरीत्यस्य मुम्बय्यां जलावतरणादनन्तरं श्रीसिंहेन सर्वमेतत् प्रतिपादितम्